उच्च्तम न्यायालय उच्चतमन्यायालयेन प्राशासनिक वाक्कील महाराष्ट्रस्य राज्यपालस्य तत्पत्रं न्यायालयं प्रति प्रस्तोतुं समादिष्टम् यस्मिन् महाराष्ट्रत राष्ट्रपति शासनम् अपवार्य राज्ये प्रशासनरचनाय देवेन्द्र फडणवीसस्य समाह्वानाय संस्तृति प्रस्तृतासीत् प्रकरण विषयकं आदेशं विज्ञापयित् तथोक्तपत्रं श्व दशवादनं यावत् न्यायालये प्रस्तोत् त्रयाणां न्यायाधीशानां खण्डपीठेन केन्द्र प्रशासनस्य वाक्कील तृषार मेहता समादिष्ट सममेव शीर्षन्यायालयेन तुषार मेहताया तदभ्यर्थना निराकृता यस्यां तेन प्रकरण विषयकाणि राज्यपालस्य सम्पर्क विवरणानि शीर्षन्यायालये प्रस्तोत् दिवसद्वयं अभियाचितमासीत् उच्चतमन्यायालयेन केन्द्रं महाराष्ट्र प्रशासनं अपि देवेन्द्र फणडवीसस्य शपथमभिलक्ष्य परिपृष्टमस्ति ध्यानास्पदं विद्यते यत् आकस्मादेव महाराष्ट्रे सञ्जातं म्ख्यमन्त्रिपदाय शपथग्रहण समारोहम् अभिलक्ष्य शिवसेना कांग्रेस एन सी पी दलै शीर्षन्यायालये याचिका पञ्जीकृतास्ति इमामेव याचिकां अवलम्बय शीर्षन्यायालय अद्य वादश्रवणं समाचरित स्म राज्ये शिवसेना कांप्रेस् एन सी पी दलानां पार्श्वे विधायकानां संख्या भाजपातुलनायां बृहत्तमा अस्ति तत्कथं फडणवीस प्रशासनरचनायै समाहूत राज्यपालेन इति याचिकायां समुल्लेख विद्यते मन की बात कार्यक्रम प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं अयोध्या भूमि विवाद प्रकरणे शीर्षन्यायालयेन श्रावित निर्णय देशवासिभि स्वागतीकृत आकाशवाण्या मन की बात कार्यक्रमेण प्रधानमन्त्री विषयेऽस्मिन् धैर्यमवधारयित् संयम सम्वलितं वृतिं च प्रदर्शयित्ं जनान् प्रति धन्यवादं समार्पयत् अम्नोक्तं ऐषमो अन्तार्राष्ट्रिय मातृभाषा वर्षत्वेन संयुक्त राष्ट्रद्वारा संघुष्ट एतदनु जगत विलुप्तानां भाषाणां संरक्षणाय बलं प्रदीयते उत्तराखण्डे स्वीय भाषाणां संरक्षणाय विशिष्ट सम्दायेन एकेन प्रारब्ध उपक्रम प्रधानमन्त्रिणा चर्चित अद्य समन्ष्ठीयमाने राष्ट्रिय कैडेट कोर इति एन् सी सी दिवसोपलक्ष्ये श्रीमोदी न्यगादीद एन् सी सी जनेष् नेतृत्वक्षमता देशभक्ति निस्वार्थ सेवा अन्शासनं कठिन परिश्रम भावनायाश्च समावेशनं करोति एतद्धि चरित्रांगभूतत्वेन अन्कर्तव्यम् दिसम्बर मासस्य सप्तमो दिनांक सशस्त्र बल ध्वज दिवसत्वेन परिपाल्यते अस्मिन् दिने वयं सैनिकान् तत्पराक्रमान् तदीयबलिदानं च स्मराम अत्र दिने नागरिकै सहभागार्थम् उन्म्खै भाव्यम् फिट इण्डिया इति उपक्रमं परिचर्चन् फिट इण्डिया सप्ताहं आमानयित् केन्द्रीय शिक्षा मण्डलस्य महत्वाति शयिनीं भूमिकां प्रधानमन्त्री श्लाधितवान् विशाखापत्तनम नगरे समुद्रात् प्लास्टिक इति अभिघट्य पदार्थानां अपसारणाय स्क्बा इति तैराक विशिष्ट सम्हस्य अभियानमपि प्रधानमन्त्रिणां चर्चितम् श्रीमोदिनोक्तं प्लास्टिक विम्क्तं भारतं विधात् संकल्पं संधार्य सर्वेरपि यथोचितं कर्म समाचरणीयम् इस्राइलदेश इसा्रइलदेशे प्रधानमन्त्रिण बेन्जामिन नेतन्याह् इत्यम्ना सार्धं सम्भूय प्रशासनं विरचनाय प्रम्ख विपक्षिणा ब्लू एण्ड व्हाइट दलेन प्रस्ताव प्रेषित मुख्य राजनैतिक प्रतिद्वन्द्विदलस्य नेत्रा बेनी गाट्ज वर्येण कथित यत् अनावश्यक रूपेण सम्ष्ठीयमान निर्वाचन अवरोद्ध एषैव मात्रमेकोपाय ध्येयमस्ति यत् इम्राइलदेशस्य महाधिवक्त्रा नेतन्याह् इत्यम् विरूद्धय भ्रष्टाचार अभियोगं प्रचालयिष्यतीति सम्द्वोषणा कृता आसीत् साम्प्रातं नेतन्याह कार्यवाहकस्य प्रशासनस्य प्रमुखपदे विराजते